अष्टादश अन्ये च व्रणिता जाता

प्रधानमन्त्री सीसीए प्रधानमन्त्री नरेन्द्रमोदी न्यगादीद यत् पाकिस्तानेन सर्वदैव प्रताड़िता धार्मिक अल्पसंख्यका सम्दाया धर्माधारेण उत्पीडितानां साहाव्यम् अस्मदीयं प्राथमिकं कर्म भवेत् प्रधानमंत्री सर्वमिदं अद्य कर्णाटकस्थ तुमकुरूस्थले जनान् सम्बोधयन् प्रत्यपादयत् अमुनोक्तं पाकिस्तानस्य प्रतिष्ठापनमेव धर्माधारेण विहितम् प्नरपि तत्र धार्मिका अल्पसमुदाया पीड्यन्ते अत्रान्तरे प्रधामन्त्रिणा नागरिकता संशोधन विधिं विरूद्धय प्रदर्शनं समाचरत प्रदर्शनकारिणोऽपि विनिन्दिता प्रधानमन्त्री प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अद्य एकविंशति राज्यानां उदीयमानेभ्य अष्टाविंशतये कृषकेभ्य कृषि कर्मन् पुरस्कारा प्रदत्ता कर्णाटकस्थले समायोजिते एकस्मिन् कार्यक्रमे प्रधानमन्त्रिणा इमे कृषका पुरस्कृता सममेव प्रधानमन्त्रिणा प्रधानमन्त्रि कृषि सम्मान निधेरन्तर्गतं कृषकेभ्य प्रदीयमानस्य धनराशे तृतीय राशि अपि प्रख्यापित एतेन धनराशिना देशस्य षट्कोटि कृषका लाभान्विता भवितार

जम्मू कश्मीर प्रदृषण नियन्त्रण मण्डलं राशिरयं प्रदेशस्य पव्जीकृतेष् विद्यालयेष् महाविद्यालयेष् च प्रवर्तितेभ्य इको क्लब इति पर्यावरण संरक्षणाय प्रतिष्ठापितेभ्य समूहान् प्रति प्रदास्यति येन विद्यालयीय महाविद्यालयीय स्तरयो पर्यावरण संरक्षणाय समुत्थापितेष् पदक्रमेष् आर्थिक न्यूनता नैव स्यात् स्वास्थ्यपत्रम् स्वास्थ्य परिवार कल्याण राज्यमन्त्री अश्विनी कुमार चौबे ब्रूते यत् केन्द्रप्रशासनस्य प्रमुख योजनान्तर्गत आयुष्मान भारतान्तर्गतं प्राय त्रि कोटि गोल्ड कार्ड इति मुक्त स्वास्थ्य सौविध्य पत्राणि प्रदास्यन्ते ते समेऽपि गोल्ड कार्ड धारका देशस्य कस्मिंधिदपि चिकित्सालये मुकत चिकित्सा सौविध्यानि प्राप्स्यन्ते